प्रवर्तमान वित्तवर्षे सकल देशीयोत्पाद मिति प्रतिशतं सार्ध दश मिता भविष्यति चंडीगढ़ प्रशासनेन अद्य प्रभृति रात्रौ दशवादनात् प्रात पंचवादनं यावत् संचरणे रोधादेश प्रवर्तित अस्ति तत्रैव गुजरातस्य अपि कोरोनाद्ष्प्रभावितेष् विंशतिनगरेष् अद्य आरभ्य मासान्तं यावत् रात्रिजनरोधादेश प्रवर्तित अस्ति साम्प्रतं यावत् देशे प्राय सप्तति लक्षोत्तर अष्टकोटि लाभार्थिभ्य सूच्यौषधानि प्रदत्तानि अद्य विश्व स्वास्थ्य दिवसो वर्तते एतद्रपलक्ष्य प्रधानमन्त्री नरेन्द्र मोदी अवदत् यत् अयं विश्व स्वास्थ्य दिवस अस्माकं स्वास्थ्यरक्षणाय अहोरात्रं लग्नान् चिकित्सान् प्रति कृतज्ञता अन्शंसा ज्ञापन दिवसत्वेन अस्ति

भवन्तोऽपि अस्माभि सह स्रक्षाया उपायत्रयस्य सड़कल्पं स्वीकुर्वन्त् म्खावरकं सन्धारयन्त् सामाजिकद्रताम् परिपालयन्त् पाणिपादं च यथासमयं प्रक्षालयन्त्

भारतीय रिजर्व बैंकस्य अध्यक्ष शक्तिकान्त दास द्वैमासिक मौद्रिक नीते घोषणां क्वन् असूचयत् यत् बैंकेन रेपोरेट इति निक्षेप मितौं रिवर्स रेपोरेट इति प्रतिवर्ति निक्षेप मितौं च न किमपि परिवर्तनं कृतम् अस्ति तेन उक्तं यत् प्रवर्तमान वित्तवर्षे सकल देशीयोत्पाद मिति प्रतिशतं सार्धः दश मिता भविष्यति परीक्षा पे चर्चा प्रधानमन्त्री नरेन्द्रमोदी परीक्षा पे चर्चाइति कार्यक्रमान्तर्गतम् अद्य सायं सप्तवादने विद्यालयीय छात्रै शिक्षकै अभिभावकैश्च साकं संवादं समाचरिष्यति परीक्षा पे चर्चाइत्यस्य कार्यक्रमस्य इदं विशालतमं संस्करणं दृश्यश्रव्यपरान्तर्जालीयमाध्यमेन समायोजयिष्यते कार्यक्रमस्य अस्य अन्तर्गतं प्रधानमन्त्री मनोविषादं विना परीक्षाया सज्जतार्थ छात्रै सह संवादं विधास्यति कार्यक्रममेतत् निध्याय स्वीयटवीटसंदेशमाध्यमेन श्री मोदी प्रोक्तवान् यत् परीक्षां सम्मुखीकर्वदभि छात्रै शिक्षकै अभिभावकैश्च सार्ध स्मरणीय लाभप्रद उपयोगी च विचारविनिमयो भविष्यति सहैव प्रधानमन्त्रिणा दृश्यश्रव्यचित्रमपि प्रदर्शितमस्ति कार्यक्रमस्य अस्य विषये केन्द्रीयशिक्षामंत्रिणा रमेशपोखरियालनिशंकेन उक्तं यत् एष प्रथम अवसरो वर्तते यदा एकाशीति देशानां विद्यार्थिभि रचनात्मक लेखन प्रतियोगितायामपि भागो गहीत

पंजाबे राज्यपालस्य चंडीगढ़स्य प्रशासकस्य वीपी सिंह बदनोरस्य च अध्यक्षतायां गतदिने सम्पन्ने उपवेशने उक्तनिर्णय विहित आसीत्

अत्रांतरे न कथमपि कार्यक्रमा सामाजिक गतिविधयश्च आयोक्ष्यन्ते प्रशासनेन प्रोक्तमस्ति यत् स्थितौ परिष्कार परिलक्ष्यते चेत् रोधादेशे पुनर्विचारो विधास्यते आरक्षिबलानि अपि रोधादेशस्य कठोरतया परिपालनाय विनिर्दिष्टानि सन्ति तत्रैव ग्रजरातस्य अपि कोरोनादष्प्रभावितेष् विंशतिनगरेष् अदय आरभ्य मासान्तं यावत् रात्रिजनरोधादेश प्रवर्तित अस्ति सामाजिक गतिविधिष् अपि प्रतिबन्ध प्रवर्तित अस्ति

सप्तदशजनाश्च कालकवलिता सूच्यन्ते दिल्ली रोधादेश विवर्धमानं कोरोना संक्रमण प्रकरणं विध्याय दिल्ली प्रशासनेन राष्ट्रिय राजधान्यां दिल्ल्यां एप्रिल मासान्तं यावत् रात्रिसंचाररोध प्रवर्तित

विगते अहोरात्रे दिल्ल्यां कोरोना संक्रमणस्य शताधिक पंचसहस्रं नूतनानि प्रकरणानि सम्प्राप्तानि दिल्ली प्रशासनेन सर्वे विभागीय अधिकारिण कोरोना दिशानिर्देशानां कठोरतया अन्पालनाय समादिष्टा सन्ति क्रोरोना स्थिति स्वास्थ्यमन्त्रालय प्रत्यपादयत् यत् साम्प्रतं यावत् देशे प्राय सार्ध सप्त सप्तति सहस्राधिक सप्तति लक्षोत्तर अष्टकोटि लाभार्थिभ्य सूच्यौषधानि प्रदत्तानि अपरत्र राष्ट्रे विगतासू चतुर्विशतिहोरासू षट्रिंशदत्तर सप्तशताधिक पंचदश सहस्रोत्तरैकलक्ष संख्याकानि नुतनानि विषाणो प्रकरणानि समक्षम् आगतानि अनेन सहैव देशे इदानीं यावत् संक्रमितानां कलसंख्या समेध्य पंचाशीत्यूतर सप्त शताधिकैक सहस्रोत्तर अष्टाविंशति लक्षाधिक एककोटि मिता संवृता मन्त्रालयान्सारं विगते अहोरात्रे प्राय षष्टिसहस्रं जना संक्रमणात् विम्क्ता साम्प्रतं स्वस्थताप्रतिशतता दविनवत्य्तर एक एक मिता अस्ति एतदतिरिच्य गते अहोरात्रे एव देशे त्रिंशद्तर षट्शतं कोरोना पीडिताः प्राणान् अत्यजन् अत्रान्तरे जवीयस्या गत्या महामार्या विवर्धमानं प्रकोपं अभिलक्ष्य भारतीय चिकित्सा अनुसन्धान परिषद् अपि कोरोना प्रारूप परीक्षण संख्यां समेधते विराम संस्कृतवार्ताया संस्करणमिदं इदानीं आकाशवाणीत प्रसार्यते

अयं दिवस स्वास्थ्यं प्रति जागरूकतावर्धनम् उद्दिश्य परिपाल्यते मानसिक स्वास्थ्यम् मात् शिशूनां च स्वास्थ्यस्य ध्यानं ऋत्दशा परिवर्तन समेतेष् महत्वपूर्ण स्वास्थ्य प्रकरणेष् भ्योपि अवधानार्थ अयं दिवस सम्पूर्णे अपि विश्वे मान्यते एतदपलक्ष्य प्रधानमन्त्री नरेन्द्र मोदी अवदत् यत् अयं विश्व स्वास्थ्य दिवस अस्माकं स्वास्थ्यरक्षणाय अहोरात्रं लग्नान् चिकित्सान् प्रति कृतज्ञता अन्शंसा ज्ञापन दिवसत्वेन अस्ति श्री मोदी एकस्मिन् ट्वीट्सन्देशे अलिखत् यत् दिनमिदं स्वास्थ्य सेवायाम् अन्संधान नवाचारयोश्च समर्थनाय अस्माकं प्रतिबद्धता द्योतकम् अपि अस्ति विश्व स्वास्थ्य दिवसावसरे असौ कोरोनोन्मूलनाय आवश्यकानां दिशानिर्देशानाम् अन्पालनाय समाहवयत् सममेव प्रधानमन्त्री प्रत्यपादयत् यत् स्वास्थ्य संरक्षणाय सर्वविधा पदक्रमा अस्माभि उत्थापनीया एतदतिरिच्य जनेभ्य उच्चग्णवताय्तं स्वास्थ्य सौविध्यं प्रदात्ं प्रशासनेन समारब्धा कतिपय योजना कोरोनोन्मूलनाय आरब्धं सूच्यौषधाभियानं चापि प्रधानमन्द्रिणा उपवर्णितम् केन्द्रीय स्वास्थ्यमन्द्री डॉ हर्षवर्धन प्रावोचत् यत् महामारी साम्प्रतमपि नैव अवसिता अतः जना दिशानिर्देशा काठोरतया अन्पालयन्त् सूचना प्रसारणमन्त्री प्रकाश जावडेकर विश्व स्वास्थ्य दिवसावसरे स्वास्थ्यकर्मिभ्यः अस्मिन् काले अग्रिमपंक्तौ अहोरात्रं स्थितेभ्य कर्मिभ्य श्भकामना प्रदत्तवान् केन्द्रीयारक्षितारक्षिबलम् केन्द्रीयारक्षितारक्षिबलस्य महानिदेशक क्लदीप सिंह सुकमा नक्सलवाद्याक्रमणस्य प्रसंगे ग्प्तचरतन्त्रस्य असफलता संभावनां सर्वथा निराकृतवान् आकाशवाण्या सह विशेष संवादावसरे तेन उक्तं यत् बलस्य भटै उग्रवादिभ्य म्खभंजकम् उत्तरं प्रदत्तम् अस्माकं क्षतिरपि अपेक्षया अल्पा जाता श्री सिंह अवदत् यत् चतुर्होरात्मके संघर्षे उग्रवादिना महती क्षति अभवत्